प्रोक्तम् लोकहिताय देशे समारब्धानां योजनानां यथोचितं प्रयोगं वव्वितानां जीवने परिष्काराय कुर्वन्तु महाराष्ट्रे प्रशासनविरचने महत् विस्मापकम् परिवर्तनम् मुख्यमन्त्रिपदाय पुन प्रतिश्रतवान् भाजपानेता देवेन्द्रफणनवीस अभिनव महाराष्ट्रस्य निर्माणाय निर्णयोऽयं प्रधानमन्त्रिणा सुखावह प्रोदीरित राष्ट्रिय कांप्रेसदल प्रमुखेण शरद पवारेण अजीतपवारस्य भाजपादले समावेशनस्य तदीयनिर्णय दलविरूद्व प्रतिपादित

प्रोक्तम् लोकहिताय देशे समारब्धानां योजनानां पदक्रमाणां च यथोचितं प्रयोगं वब्वितानां जीवने परिष्काराय कुर्वन्त् असौ राष्ट्रपतिभवने समायोजिते पञ्चाशत्तमे राज्यपालानाम् सम्मेलस्य श्भारम्भावसरे सम्भाषते स्म सामान्यजनानां समस्या श्रवणाय तद्न्मूलनाय यथाविधं कार्याचरणार्थमपि प्रधनमन्त्रिणा राज्यपाला निवेदिता श्री नरेन्द्रमोदिनोक्तं देशोन्नतये राज्यपालानां योगदानं संविधानेन महत्वातिशायिनं समुपवर्णितमस्ति राज्यपाल सम्मलेनम् तत्रैव द्वि दिवसात्मकस्य उपराज्यपालानां सम्मेलनस्य समुद्घाटनावसरे राष्ट्रपति रामनाथ कोविन्द अब्रवीत् यत् देशस्य सांवैधानिक व्यवस्थायां राज्यपालानां महत्वपूर्णा भूमिका विद्यते जनजातीयानां सशक्तिकरणं समग्रविकासश्च राष्ट्रपतिना राष्ट्रिय सुरक्षा विषयत्वेन सम्पवर्णितम् तेनोक्तं सांवैधानिक अधिकारिकाणां प्रयोग पूर्वकं राज्यपाला जनजातीयानां वञ्चितानां च जीवनोत्कर्षाय समुचित मार्गदर्शनं कर्तुमर्हन्ति जल संसाधनानां संरक्षणार्थं जल शक्ति अभियानं जनान्दोलनं विधातुमपि राष्ट्रपतिना राज्यपाला सम्दीरिता सम्मेलनेऽस्मिन् सम्पस्थितेन अमितशाहेन राज्यपालानां भूमिका केन्द्रराज्ययोर्मध्ये सामञ्जस्य स्थापनदृष्ट्या महत्त्वाधायिनी प्रोदीरिता महाराष्ट्रम् महाराष्ट्रे प्रशासनविरचने विस्मापकम् महत्परिवर्तनम् मुख्यमन्त्रिपदाय प्न प्रतिश्रतवान् भाजपानेता देवेन्द्रफणनवीस राष्ट्रिय कांप्रेस्दलनेत्रे अजित पवाराय उपमुख्यमन्त्रिपदम् महाराष्ट्रस्य राज्यपालेन भरतसिंहकोश्यारी वर्येणायाद्य राजभवने एकस्मिन् सामान्य समारोहे नेतारो पदगोपनीयतायै प्रतिश्रावितौ अभिनव महाराष्ट्रस्य निर्माणाय निर्णयोऽयं प्रधानमन्त्रिणा सुखावह प्रोदीरित नेतृद्वय नेतृत्वे महाराष्ट्र सर्वोन्नतिपथं प्राप्स्यति इत्यपि भणितवान् प्रधानमन्त्री अपरत्र राष्ट्रिय कांप्रेसदल प्रमुखेण शरद पवारेण अजीतपवारस्य भाजपादले समावेशनस्य तदीयनिर्णय दलविरूद्ध प्रतिपादित राजनाथसिंह रक्षामन्त्रिणा राजनाथसिंहेन प्रतिपादितम् आत्मसम्मानं संरक्षित्ं देशोत्कर्षं च उद्श्य युवान साम्प्रतं सेनायां समीहन्ते समावेष्ट्म् सेवानिवृत्त सैनिका सेवानिवृत्त वृत्तिमधिगन्त् मा स्म भवन् चिन्तारता एनां समस्यां निराकर्त् प्रशासनं सर्वसम्भव प्रयासान् विधत्ते रक्षामन्त्री उत्तरप्रदेशे लखनउ नगरस्थे रक्षा लेखा पेंशन महानियन्त्रकै समायोजिते पेंशन इति सेवानिवृत्त वृत्ति न्यायालयस्योद्घाटनकाले सम्बोधयति स्म जम्मूकश्मीरम् पाकिस्तानपक्षत पुनरेकवारं तर्जनीयं संघर्षविरामोल्लंघनम अकस्मात अकारणं चापि केन्द्रशासितप्रदेशस्य जम्मुकश्मीरस्य जम्म्सम्भागस्थायां राजौरी नियन्त्रणरेखायां जना सैन्यस्थात्राणि चाभिलक्ष्य पाकिस्तानेन कृता गोलिकाप्रहारा भारतीयसेनापि मुखभञ्जनकरं प्रत्युत्तरं प्रददाति क्षते काचिदपि सूचना साम्प्रतं यावत् नैव समधिगता मन की बात प्रधानमन्त्री नरेन्द्रमोदी मन की बात कार्यक्रमे श्व एकादशवादने स्वीयं मनोगतम् प्रस्तोष्यति